प्रधानमंत्री नरेन्द्र मोदी अद्य दृश्यश्रव्यांकन माध्यमेन भारत बांग्लादेशयो मध्ये मैत्री सेतो उद्घाटनं करिष्यति संसद समान्य कार्यावधि अद्यारभ्य प्रात एकादशवादनात् सायं षड्वादनं यावत् भविष्यति यूरोप यात्रायां चतुर्थान्तिम स्पर्धायां भारतीय हॉकी दलेन गतदिने बेल्जियम देशस्य एंटवर्पनगरे ब्रिटेनदलं त्रीणि द्वे अंकान्तरालेन पराजितम्

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्त् सामाजिकद्रता परिपालयन्त पाणिपादं च यथासमयं प्रक्षालयन्त् इदानीं वार्ता विशदीकृत्य मोदी गीता प्रधानमंत्री नोन्द्रमोदी अद्य एकविंशति व्याख्या समन्विताया श्रीमन्द्रगवत् गीताया एकादश खण्डानां लोकार्पणं करिष्यति

अत्रावसरे जम्मूकश्मीरस्य राज्यपाल मनोजसिन्हा अथ च डॉ करणसिंह उपस्थास्यत अस्माकं वार्ताहरेण सूचितं यत् प्रथमोड़यं अवसर यदा विविधव्याख्या समन्विता श्रीमद् भगवत् गीता प्राकाश्यम् आगता मोदी सेत् प्रधानमंत्री नरेन्द्र मोदी अद्य दृश्यश्रव्यांकन माध्यमेन भारत बांग्लादेशयो मध्ये मैत्री सेतो उद्घाटनं करिष्यति अत्रावसरे प्रधानमंत्री त्रिपुरायां नैकासाम् आधारिक परियोजनानाम् आधारशिला अपि स्थापयिष्यति

इयं हि त्रिपुराराज्यस्य बंग्लादेशे च भारतीयसीमाया मध्ये प्रवहति

ऐषम स्वतंत्रता दिवस तादृश भवेत् यत्र हुतिं गतानां वीरभटानां स्वतंत्रता सेनानीनां च भावना अन्तर्निहिता स्यात् श्रीमोदी स्वतंत्रता दिवस आयोजनाय संरचिताया राष्ट्रिय समित्या अन्तर्जालिकम् उपवेशनं संबोधयति स्म संसद संसद समान्य कार्यावधि अद्यारभ्य प्रात एकादशवादनात् सायं षड्वादनं यावत् भविष्यति गतदिने विंशति दलानां प्रतिनिधीनाम् उपवेशने संसद कार्यसमित्या निर्णयोड़यम् स्वीकृत सदन द्वयस्य सदस्या निर्धारितस्थलेष् उपविश्य कार्यम् करिष्यन्ति अवधेयम अस्ति यत् कोविड संक्रमणं निध्याय अयं निर्णय स्वीकृत

हॉकी यूरोप यात्रायां चतुर्थान्तिम स्पर्धायां भारतीय हॉकी दलेन गतदिने बेल्जियम देशस्य एंटवर्पनगरे ब्रिटेनदलं त्रीणि द्वे अंकान्तरालेन पराजितम्